नैक चक्रीय परिचर्चानन्तरं विश्वविदयालयेन प्रसारिते वक्तव्ये स्पष्टीकृतं यत् छात्रै किदृग्विधमपि सेवोपयोगिता श्ल्कं नैव प्रदास्यते

अधिसूचना प्रसारणेन सममेव नामाङ्कन प्रक्रिया आरप्स्यते प्रत्याशिभि जनवरी मासस्य एकविंशति दिनाइकं यावत् नामाइकन पत्राणि प्रपूरयित् शक्ष्यन्ते प्नश्च नामाङ्कन पत्राणां निरीक्षणं मासेऽस्मिन् द्वाविंशे दिनाङ्के भविष्यति अस्मदीयो वार्ताहर विज्ञापयति यत् प्रत्याशित्वेन नामपरावर्तनाय अन्तिमा तिथि अस्य मासस्य चतुर्विशो दिनाड्क भविता सप्तति सदस्यात्मिकाया विधानसभाया कृते मतदानानि आगामि मासस्य अष्टमे दिनाड़के भविष्यति मतगणना प्रेब्वरी मासस्य एकादशे दिनाड़के भविता विधानसभा निर्वाचनेष् मतदातृणां श्रेष्ठ सहभागितात्वार्थ दिल्ल्या मुख्य निर्वाचन कार्यालयेन विशिष्टम् अभियानमेकम् आरब्धमस्ति

गतरात्रौ राज्य विधानसभाया विशिष्टाधिवेशनं संबोधयन् असौ सुदृढं प्रत्यपादयत् यत् तदीय शासनं नैव विश्वासघातं न च नागरिकाणाम् अहितं करिष्यति क्रिकेट् भारतॉस्ट्रेलिया देशयो स्पर्धा त्रयात्मिकाया अन्ताराष्ट्रियैक दिवसीय क्रिकेट् क्रीडा मालिकाया प्रथमं द्वन्द्वम् अद्य म्म्बय्या वानखेड़े क्रीडाङ्गणे आयोजयिष्यते

आकाशवाण्या अस्या स्पर्धाया साक्षाद्विवरणं क्रमश हिन्द्यांग्ल भाषयो दिने एकवादनात् रात्रौ दशवादनं क्रीडासमाप्ति पर्यन्तं वा प्रसारयिष्यते

पदक तालिकायां दिल्ली तृतीयं ग्जरातं च चत्र्थ स्थानं भजेते बैडमिण्टन् इण्डोनेशिया मास्टर्स् सुपर पञ्चशतेत्याख्याया बैडमिण्टन् स्पर्धा मालिकाया द्वितीयचक्रे अद्य ऐदम्प्राथम्येन ओलिम्पिक् पदक विजेत्र्यो भारतीय बैडमिण्टन् तारके पीवीसिन्ध् साइना नेहवालश्च स्व स्व क्रीडाकौशलं प्रदर्शयिष्यत

इति वार्ता